गहमन्त्री गृहमन्त्री अमितशाह व्यज्ञापयत् जम्मूकश्मीरे सर्वतोभावेन स्थिति सामान्या वर्तते राज्ये सर्वेभ्य पञ्चनवत्य्त्तरैक शतं आरक्षि स्थात्रेष् प्रवर्तिता प्रतिबन्धा अपाकृता असौ राज्यसभायां पृष्ट प्रश्नान् सम्त्तरति स्म श्रीशोहेनोक्तं यत् अन्तर्जालीय सेवानां प्नर्सञ्चालन निर्णय जम्मूकश्मीरस्य अधिकारिणां परामर्शान्ग्णं क्षेत्रस्य स्रक्षा स्थितिं च अवधार्मैव विधास्यते राज्ये सम्चित मात्रायाम् आवश्यक वस्तूनि सम्लपलब्धानि सन्ति सर्वे विद्यालया सम्द्घटिता स्थिरभाष सेवाश्च प्रवर्तिता ग़हमन्त्रिणा सविशेषम्दीरितं यत् उर्दू आंग्लभाषयो प्रसार्यमाणा सर्वा अपि प्रसारण वाहिन्य समाचारपत्राणि च सामान्यरूपेण कर्मरतानि सन्ति प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत् प्रधानमन्त्रि आवास योजना उपक्रमेण जन जीवन स्तरे समुल्लेखनीय परिष्कार अभवत्

आवास खल् नास्ति केवलं भिति नाम प्रत्युत्त स्वप्नाकांक्षा पूर्तिस्थानं हि आवास इति महाराष्ट्रम् कांग्रेस राष्ट्रवादि कांग्रेस्दलयो वरिष्ठनेतार अद्य नवदिल्ल्यां मन्त्रयिष्यन्ति अत्रान्तरे महाराष्ट्रे शिवसेनादलेन सार्ध मिलित्वा प्रशासन विरचन विषयं परिचर्चिष्यते जम्मूकश्मीरम् जम्मूकश्मीरप्रशासनं ग्रामं प्रति प्रत्यावर्तनं इति कार्यक्रमस्य द्वितीयं चरणं समारब्धयित्ं सज्जीभूतमस्ति राज्यप्रशासनेन प्न प्रवर्त्यमाणस्य कार्यक्रमस्यास्य विस्तृतविवरणं प्राशासनिक वेबफलके प्रकाशितमस्ति

म्ख्य निर्वाचनाय्क्त म्ख्य निर्वाचनाय्क्तस्य स्नील अरोड़ा वर्यस्य नेतृत्वे निर्वाचनायोग झारखण्डे समायोजयिष्यमाणानां भावि विधानसभा निर्वाचनानां प्राक् सज्जताः समीक्षते म्ख्यनिर्वाचनाय्क्तेन निर्वाचनाय्क्तेन अशोकलवासावर्येण स्शीलचन्द्रेण अथ च विभिन्न राजनैतिक दलै समम् राच्यां सम्नष्ठितं उपवेशनम् राज्यसभा गुहमन्त्री राष्ट्रिय नागरिकता पञ्जीकरणे धर्म सभाश्रित्य भेदभाव गृहमन्त्रिणा अमितशाहेन सर्वथा निराकृत अम्नोक्तं अशेषदेशे नागरिक पञ्जीकरण प्रक्रिया विधानवधौ सर्वेड़पि धर्मान्यायिन अत्र समावेशयिष्यन्ते नागरिकता संशोधन विधेयकस्य राष्ट्रिय नागरिकता पञ्जीकरणस्य च मध्ये नास्ति खलु समानता इत्यपि प्रत्यपादयत् गृहमन्त्री अमितशाह

विधेयकेऽस्मिन् व्यावसायिक दृष्टया अंगीकृतं स्थानापन्न मातृत्वम् अवैधीकृत्य निःस्वार्थ भावनया समाश्रितस्य स्थानापन्न मातृत्वस्य प्रावधानम् उप कल्पितं विद्यते राजनाथ सिंगापुरम् भारत सिंगाप्रयोः सशस्त्र बलानां मध्ये समेधमानं संयुक्त सैन्याभ्यास सहभागिता विषये भारत सिंगाप्रेति देशद्रयेन तोषः प्रकटितः प्रतिरक्षा मन्त्री राजनाथ सिंहः सिंगापुरस्य समकक्षेण हेंग स्वी केट वर्षेण साधं सिंगापुरे अद्य समाचरितम् चतुर्थं भारत सिंगापुर रक्षामन्त्रिणां उपवेशनम् आकाशवाणी विज्ञापनम् आकाशवाण्या समाचार सेवा प्रभागेन संस्कृत कश्मीरिभाषयो कृते अस्थायिरूपेण वार्तानुवादाय वार्ताप्रवाचनाय च आवेदनानि आमन्त्र्यन्ते आवेदनस्यान्तिमतिथि दिसम्बरमासस्य षष्ठ दिनांक विद्यते